प्रधानमन्त्रिणा प्रत्यपादि यत् अभिनव रेलयानानि एतानि एकं भारतं श्रेष्ठं भारतम् इत्यस्य सौन्दर्य प्रतीकभूतम्

प्रथमे दिवसे एकनवति सहम्राधिकैकलक्ष जनेभ्य स्च्यौषध सौविध्यम्

अपि च क्रीडावार्तायाम् ऑस्ट्रेलियां विरूध्य अनुवर्तमानायां चत्र्थ निकषस्पर्धायां भारतेन प्रथमपर्याय षड्त्रिंशतथिक त्रिशतं धावनाड्क यावत् समाप्त ऑस्टेलियादलं चत्पञ्चाशत् धावनाकै अग्रत्वं भजते

प्रधानमंत्री केवडिया प्रधानमन्त्री नरेन्द्रमोदी अद्य द्रश्यश्रव्य परान्तर्जालीय माध्यमेन समायोजिते एकिस्मन् कार्यक्रमे देशस्य विभिन्न दिग्भागेभ्यः सञ्चलितानि रेलयानानि हरितध्वज प्रदर्शनप्रस्सरं गमनानुमतिं प्रायच्छत् एतानि रेलयानानि स्टैच्र ऑफ युनिटि इति एकात्म भारत प्रतिमां प्रति निर्बाधगत्या यान्ति अनेन रेलयानसौविध्येन यात्रिणां सुविधा अतोऽपि सुगमतया सम्पत्स्यते इत्याकल्यते प्रधानमनित्रणा श्रीनरेन्द्रमोदिना प्रोदितं यत् अद्यतनं दिवसोऽस्म्भ्यं ऐतिह्यत्वेन विद्यते यतोहि अद्य एकं भारतं श्रेष्ठं भारतं इति स्वीय सुन्दरतां परिलक्षयति

तेन स्पष्टीकत यत् अद्य भारतीय रेल विभागस्य अभियान सरदारवल्लभ भाई पटेलवर्यस्य च परिकल्पना समानरूपेण समावेशिते

अमुना समुदीरित यत् केवडिया भारतस्य प्रमुख पर्यटनस्थलेष् प्रामुख्य भजमाने विद्यते आविश्वस्य पर्यटका इदं स्थलं प्रति आगच्छन्त सन्ति अत्र समागतानां पर्यटकानां संख्या संयुक्ताराज्यामेरिकीयं स्टैच् ऑफ लिबर्टि इति प्रतिमामानांकं अत्याक्रमत असौ अचिरमेव लक्षश पर्यटकानां आगमनाय आशान्वितो वर्तते प्रधानमन्त्रिणामोदिना प्रोक्त यत् एतत्परियोजनाभि केवडिया जनजातीय वास्तव्यानां जीवने सकारात्मकं परिवर्तनं विधीयते केवडिया जनेभ्यो नैका सुविधा सन्ति उपकल्पिता

ह्य प्रथमे दिवसे एकनवति सहम्राथिकैकलक्षसख्याकेभ्यो जनेभ्य इदं सौविध्यं सुनिश्चितीकृतम् अवधेयं तथ्यमिदं यत् प्रधानमन्त्रिणा मोदिना ह्य दृश्यश्रव्य परान्तर्जालीय माध्यमेन विश्वस्य प्रथम संक्रमणरोधाभियान समाख्धम् आसीत् स्वास्थ्यमन्त्रालयेन स्पष्टीकृत यत् स्वदेशीय सूच्यषधयो कथमपि दृष्प्रभावो नैव दृश्यते न कोऽपिजन अस्मात् चिकित्सालयेष् प्रवेशित कोविशील्ड सूच्यौषधं सवेभ्य राजेभ्य अपि च कोवैक्सीन इत्याख्यं सूच्यौषधं द्वादश राज्येभ्योऽस्ति सम्प्रेषितम्

प्रथमचरणान्तर्वर्तिने कोरोणारोधि सूच्यौषध प्रयोगाय सर्वेष् राज्येष् समेष् केन्द्रशासित प्रदेशेष् च आहत्य षडधिक त्रिसहम्र संख्याकानि सूच्यौषध प्रयोगकेन्द्राणि सन्ति विनिर्मितानि

विगते अहोरात्रावधौ एक शताधिक सप्तदश सहम्राधिका जना अस्माद रोगाद विमुक्ता देशे आहत्य पञ्चाशीत्यधिक अष्ट शतोत्तर षण्णवति सहम्राधिककै लक्षाधिकैक कोटि जना स्वस्थभूता गत चतुर्विशतिहोरासु चतुश्चत्वारिशदाधिकैक शतोत्तर पञ्चदश सहम्रं नूतनप्रकरणानि पञ्जीकृतानि आहत्य देशे संक्रमितजनानां संख्या प्रवर्ध्य नव शताधिक स्प्तपञ्चाशत् सहम्रोत्तर पञ्च लक्षाधिकैक कोटि अभवत् स्वास्थ्यमन्त्रालयानुसार बिगते अहोरात्रे एकाशीत्यधिकै एकशते जना कालकवलिता सूच्यन्ते

अद्य भारतेन स्वीयं पर्यायं क्रीडकद्वमस्य हानिप्रस्सरं द्विषष्टिर्धावनाकेभ्य समारब्धम् आसीत् अद्य तृतीय दिवसावसानं यावत् आस्ट्रेलियादलं न कस्यापि क्रीडकस्य हानौ एकविंशति धावनाइकान् अर्जयत्

इत प्राक् भारताय भव्यप्रदर्शनपूर्वक शाईलठाकुर वारिङ्न सुन्दरश्च धावनाङ्कान् अर्धशतक समधिगतवन्तौ शार्दलठाकुर सर्वाधिक सप्तषष्टिधावनाङ्कान् समधिगच्छत् अपर वॉशिङ्गटन सुन्दर संकटेऽस्मिन् काले भारताय द्विषष्टिधावनाङ्कानी योगदानमकरोत् ऑस्टेलिया पक्षत तीव्रकन्दुकक्षेपकर्तृषु अन्यतम जोश हेजलवुड् इत्यसौ पञ्चक्रीडकान् क्रीडातो बहिष्करोत् ऑस्ट्रेलिया दलेन स्वीये प्रथमे पर्याये ऊनसप्तत्यधिक त्रिशंत धावनाङ्कानि समधिगतानि आसन् एवं प्रकारेवा तइलं क्रीडायां प्रथमपर्याय द्रशा त्रयख्निंशत् धावनाड़कै अग्रत्वं अभजत अवधेयं तथ्यमिदं यत् चतुर्णा स्पर्धानां श्रृंखलायामस्यां प्रथमां स्पर्धां ऑस्ट्रेलिया दलं अपि च द्वितीयां स्पर्धा भारतं विजितवत्